कर्णाटक प्रधानमन्त्री प्रधानमन्त्री श्रीनरेन्द्र मोदी दिवस द्वयात्मिकाम् आधिकारिक यात्राम् उद्दिश्य अद्य कर्णाटकान् प्रयाति स तत्र तुम्क्रु क्षेत्र स्थे कनिष्ठ महाविद्यालय परिसरे एक विंशतये प्रदेशेभ्य कृषिकर्मन् प्रस्कारान् वितरिष्यति विगत वर्षीयेष् शस्य ऋतृष् अभिलेखनीयेभ्यः कृष्युत्पादनेभ्यः इमे प्रदेशाः प्रशासनेन प्रस्क्रियमाणा सन्ति एतदतिरिच्य श्रीमोदी कृषि सम्मान योजनानाया अन्तर्गत देशस्य अष्ट कोटि कृषकेभ्यः विगत डिसेम्बर मासात् आगामि फेब्र्अरी मासान्ताय कालावधये अनुदान राशीन् अपि निर्गमयिष्यति ततोऽद्य सायं तस्य प्रतिरक्षाऽनुसन्धान संघटन परिसरं प्रति गमनस्यापि कार्यक्रमो विद्यते प्रधानमन्त्रिणा श्व बेंगलूरौ सप्ताधिक शत तमी राष्ट्रिय विज्ञान संगोष्ठी समुद्घाटयिष्यते

स भूटान देशाधिपेन श्रीलंकाया राष्ट्रपति प्रधानमन्त्रिभ्यां मालदीप राष्ट्रपतिना नेपाल बांग्लादेशयो प्रधानमन्त्रिभ्यां च संभाष्य तेभ्य स्वदेश वासिनां पक्षतो हार्दिकी शुभकामना व्यक्तीकृतवान् तेनोदीरितं यदेष देश स्वीय प्रतिवेशि राष्ट्रै समं शान्ति सौहार्द पूर्णान् सम्बन्धान् सन्धारयित् सततं प्रतिबद्धोऽस्ति रविशंकरप्रसाद केन्द्रीयो विधि मन्द्री रवि शंकर प्रसाद अब्रदीत् यत् संशोधित नागरिकताऽधिनियमं विरुध्य विगते मासि देशस्य विभिन्नेष् भागेष् दुरापादितानां हिसा घटनानां सन्दर्भ पोप्लर फ्रंट ऑफ इंडिया इति संघटनस्य भूमिका प्रधान्येन प्रकाशमायाताऽस्ति ह्यो नवदिल्ल्यां वार्ताहैर सम्भाषण क्रमे स अवदत् यदेतत् संघटन विरुध्य भारतीय इस्लामिकच्छात्रान्दोलन गुल्मेन सह सम्बद्धता समेता नैके आरोपा शनै शनै प्रकाशमायान्ति श्रीप्रसाद स्पष्टमकरोत् यद् गृह मन्त्रालय सन्दर्भेऽस्मिन् शीघ्रमेव सुदृढ साक्ष्य जातानि समाधत्य समुचित पदक्षेपान् ग्रहीष्यति